विद्यून्मन्त्रालयः स्पष्टमकरोत् यदद्य रात्रौ व्यापकम् विद्यूत् प्रकाश निर्वापणम् सफलीकत्त् तेन समपेक्षितं सम्चित प्रबन्धनं परिकल्पितमस्ति

प्रधानमन्त्री कोरोना प्रकाशपञ्जः प्रधानमन्त्रिणः श्रीनरेन्द्र मोदिनः समाह्वानम् अनुसृत्य अद्य अशेषमपि राष्ट्रं कोरोनां विरुध्य संघर्षे स्वीयां सामृहिकीम् एकतां प्रदर्शयितृम् रात्रौ नववादन वेलायां नव निमेष पर्यन्तं स्व गृह गतानि प्रकाशोपकरणानि निरस्य गेहादृ बहिज्योंतिर्मालां रचयिष्यति विगते श्क्रवासरे दृश्य श्रव्य प्रणालिकया राष्ट्रं प्नः समुद्रोधयता प्रधानमन्त्रिणा समाहूतमासीत् यदद्यतन्यां तिथौ वयम् पुनरेकवारम् अशेष देशे सामूहिक प्रकाश पूञ्जं रचयित्वा इमां तमोमयीं कोरोना महामारीं विरुध्य स्वीयाम् अखण्डाम् एकतां प्रदर्शयिष्यामः श्रीमोदिना स्वीयोद्वोधने आशा प्रकाशिता आसीत् यद् जनाः अवसरेऽस्मिन् यथोचितां सामाजिकीम् अन्तराल मर्यादाम् अनुपालयिष्यन्ति